एतत्परिष्काै तेभ्य न्तनाधिकारा अवसरा स्वातन्त्र्यञ्च प्राप्स्यते इति प्रधानमन्त्री मोदी अद्य पूर्वाह्ने स्वीये मन की बात इति कार्यक्रमे देशवासिभि साकं विचार विनिमयं व्यदधात् तेन प्रोक्तं प्रौद्यौगिक्या साहाय्येन संस्कृति भावनात्मकं सम्बलं अधिप्राप्नोति ग्रोनानकस्य विचारा वैकूंवरत वेलिङ्गटनं सिंगापुरत दक्षिणाफ्रीकां यावत् गुञ्जायमाना इति देव दीपावली इति वैश्विक दीपोत्सवकार्यक्रमे भागं ग्रहीत् प्रधानमन्त्री श्रीनरेन्द्र मोदी श्व वाराणसी यात्रां सम्पादयिष्यति प्रधानमन्त्रिण दीपज्वालेन साकं दीपोत्सवोडयं समारप्स्यते गंगा नदीम् उभयत एकादश लक्षसंख्याका दीपा ज्वालयिष्यन्ते इति केन्द्रीयो गृहमन्त्री अमितशाह कृषकान् समाश्वासयत् यत् प्रशासनं तै साक संवादार्थं तत्समस्या सामाधात् वर्तत सन्नद्वम्

स्वास्थ्यलाभमिति षड् अष्ट दशमलवोत्तर त्रिनवतिमितास्ति संवृत्ता

प्रिया श्रोतार कोविड नाइन्टीन इति वैशिक संक्रमणं विरुध्य राष्ट्रं ऐक्यभावनया युध्यति भवन्तोऽपि संक्रमणं इदं परास्त् सन्नद्वा भवन्त् मुखनासिकाच्छादकं सामाजिकदौर्यानुपालनं पाणिपाद प्रक्षालनञ्च इति उपायत्रयं सर्वदैव अवधार्यन्तु यतोहि कोरोना प्रतिरोधी नियमपालनमेव कुशाग्रबुद्धि परिचायकम् मन की बात प्रधानमन्त्रिणा श्री नरेन्द्रमोदिना प्रतिपादितं यत् अचिरमेव विहितै कृषिपरिष्कारै कृषकेभ्यो नूतनानि सम्भावना द्वाराणि समुद्घाटितनि सन्ति इति अद्य पूर्वाहे एकादश वादने स्वीये मन की बात इति कार्यक्रमे भाषमाणो नरेन्द्र मोदी अव्रवीत् यत् कृषका सुदीर्घकालात् अस्मै परिष्काराय प्रतीक्ष्यमाणा आसन् एतत् प्रशासनेन हि परिष्कारोऽयं सम्पूरित प्रधानमन्त्रिणा स्पष्टीकृतं यत् संसदि बृहन्मात्रायां विचार विमर्शानन्तरं कृषि परिष्कारा इमे विधिरूपेण सवृत्ता एतै परिष्काै न केवलं कृषका बन्धनै विम्क्तीक्रियन्ते अपित् तेभ्यो नूतनाधिकारा अवसराश्चापि प्रदीयन्ते इति प्रधानमन्त्रिणा युवान प्रार्थिता यत् ते निकटवर्ति कृषकान् कृषीक्षेत्रीय नवाचार विषये अपि च अचिरमेव विहिते कृषि परिष्कार विषये च जागरूकतया बोधयेय् इति प्रधानमन्त्रिणा श्रीमोदिना प्रौद्योगिक्या सांस्कृतिक रिक्थं अधिकाधिकजनेष् सम्प्रापणाय अपि सबलं प्रतिपादितम् प्रधानमन्त्रिणा मोदिना प्रसन्नता आपादिता यत् देव्या अन्नपूर्णाया प्राचीनतमा प्रतिमैका शतं वर्षानन्तरं स्वदेशं प्रत्यानीयते एतदर्थं तेन कनाडा प्रशासनाय अन्य जनेभ्यश्च कार्तज्ञं प्रकटीकृतम प्रधानमन्त्री मोदी न्यूजीलैण्डदेशीयं नवनिर्वाचितं संसद सदस्यमपि प्राशंसयत् अमुना प्रोदितं यत् भारतीय संस्कृते प्रचास्प्रसार प्रत्येकं भारतीयाय गौरवास्पदं अनुभावयति इति प्रधानमन्त्री मोदी अब्रवीत् यत् श्व ग्रो नानकदेवस्य एक पञ्चाशदधिक पञ्चशतं प्रकाश पर्व आमानयिष्यते अमुना प्रत्यपादि यत् गुरो नानकदेवस्य सम्पदेशा वैंकूवरत वेलिङ्गटन सिंगाप्रत दक्षिणाफ्रीकां यावत् गुव्जायमाना वर्तन्ते इति दिसम्बर मासस्य पञ्चमे दिनांके महान् विचारकस्य दार्शनिकस्य श्रीअरबिन्दोवर्यस्य प्रण्यतिथि आमानयिष्यते असौ युवकान् समध्यर्थयत् यत् ते श्रीअरबिन्दोवर्यस्य व्यक्तित्व विषये अधिकाधिकं जानीय् श्री अरन्विन्दो वर्यस्य शिक्षा यूनां प्रशिक्षणाय आसीत् इति प्रधानमन्त्री मोदी अब्रवीतु यतु दिसम्बर मासस्य षष्ठे दिवसे बाबा साहेब भीमराव आम्बेडकरस्य पृण्यतिथि आमानयिष्यते प्रधानमन्त्रिणा मोदिना अस्मिन् दिवसे राष्ट्राय संकल्पं स्वीकर्त्रं एक व्यक्तिरूपेण संविधान द्वारा प्रदत्त कर्तव्यानाम् अन्पालनाय प्रार्थितम् इति

श्रीमोदिना स्पष्टीकृतं यत् इदं संक्रमणं विरुध्य कीदृशी अपि अनवधानता महत्कष्टकरी सेत्स्यति अमुना सर्वे देशवासिना कोरोना इति वैश्विक संक्रमणं विरुध्य प्रचाल्यमाणं संघर्षं अतोऽपि स्ट्टढीकर्त्ं प्रार्थितम् पीएम वाराणसी प्रधानमन्त्री नरेन्द्र मोदी श्व स्वीय संसदीय क्षेत्रस्य वाराणस्या यात्रां विधास्यति तत्रासौ राष्ट्रिय राजमार्ग ऊनविंशति इत्यस्य वाराणसी प्रयागराजयो खण्डान्तर्गतं विनिर्मितां षड् पंक्ति संवलितां राजमार्ग परियोजनां लोकाय समर्पयिष्यति इति स्वीय यात्राक्रमे असौ तत्र देवदीपावली कार्यक्रमे सहभागं करिष्यति देव दीपावली पर्व वैश्विक स्तरे दीपानां सोत्साहं आयोज्यमाणं पर्व वर्तते यद्धि प्रत्येकस्मिन् वर्षे कार्तिक पूर्णिमायां आमान्यते इदं पर्व वाराणस्या राजघाट इत्यस्मिन् स्थले प्रधानमन्त्रिणो मोदिनो दीप प्रज्वालनेन सह समारप्स्यते तदनन्तरं गंगा नदीं उभयतः एकादश लक्ष दीपा ज्वालयिष्यन्ते इति प्रधानमन्त्री स्वीय यात्रावधौ काशीविश्वनाथ परिसरं सारनाथ पुरातत्वविभागीय परिसरं अपि अवलोक यिष्यते इति शाह फार्मर्स गृहमंत्रिणा अमित शाहेन आन्दोलन कारिण कृषका सम्प्रार्थिता यत् प्रशासनं तै साकं विचार विनिमयाय वर्तते सन्नद्वम् वार्ताहै सहभाषमाणो अमितशाहो अब्रवीत् यत् केन्द्रीय कृषि मन्त्रिणा कृषका आगामि दिसम्बर मासस्य तृतीये दिनाड़के परामर्शाय समाहता सन्ति तेन इदं अपि स्पष्टीकृतं यत् केन्द्रप्रशासनं कृषिवलानां समस्यां समाधात्ं अपि च तेषां याचना सम्पूरयित्ं सर्वत्मना प्रयतते इति इद संस्कृतवार्ता प्रसारणम् आकाशवाणीत प्रसार्यते

कोविड अपडेट स्वास्थ्यमंत्रालयेनोक्तं यत् देशे विगते अहोरात्रे कोरोना संक्रमणस्य दशाधिक अष्ट शताधिक एकचत्वारिशत् सहस्रं न्तनप्रकरणानि पञ्जीकृतानि अत्रान्तरे संक्रमितजनानां संख्या विवध्य विंशत्यधिक नवशताधिक द्विनवति सहस्रं यावत् संवृत्ता एवञ्च षड्नवत्यधिक चत्र् शतं जना कालकवलीभूता अध्नापर्यन्त मृतकानां संख्या षड्नवत्यधिक षड् शताधिक षड्त्रिंशत् सहस्राधिक एक लक्ष अभूत् सहैव अष्टनवत्यधिक द्रिशताधिक द्रिचत्वारिशत् सहस्र रोगिण स्वस्थीभूता देशस्य स्वास्थ्यलाभ प्रतिशतं अष्ट षड् दशमलवोत्तर त्रिनवतिमितोऽस्ति संवृत्त अफगान ब्लास्ट अफगानिस्तानस्य गजनीप्रान्त अद्य एकेन कारयान विस्फोटकेन आकुलित विस्फोटकेऽस्मिन् प्राय त्रिंशत् जना कालकवलीभूता एवञ्च अफगान सुरक्षा बलस्य चत्र्विंशति सैनिका व्रणिता आधिकारिकरूपेण संसूचित अस्ति यत् विस्फोटकस्य तीव्रतां आलक्ष्य व्रणितेष् उपचिति सम्भाव्यते अयं विस्फोट सार्वजनिक स्रक्षा बलस्य परिसरं लक्ष्यीकृत्य विहितम् आसीत् अस्मात् कारणात् परिसर परित नागरिक आवासा अपि क्षतिप्रस्ता अभूवन् अस्य विस्फोटकस्य उत्तरदायित्वं अध्ना पर्यन्तं न केनापि आतङ्किग्ल्मेन उररीकृतमस्ति राजस्थान पीयूष गोयल रेलमन्त्रिणा पीयूष गोयलेन उक्तं यत् केन्द्रप्रशासनेन गत षड् वर्षेष् रेलविभागस्य आधारभूत संरचनायै यात्रीणां स्विधायै च अभूतपूर्व कार्याणि अन्ष्ठितानि अद्य बांदीकुई डिगवाड़ा रेलखण्डस्य विद्युतीकृत खण्डस्य उद्घाटनं कुर्वता गोयलेनोक्तं यत् रेलविभागेन सर्वेष् क्षेत्रेष् महत्साफल्यं समधिगतम् इति क्रिकेट भारतं आस्ट्रेलिया देशं च अन्तरा एकदिवसीय स्पर्धामालिकाया द्वितीया स्पर्धा आस्ट्रेलिया देशेन एकपञ्चाशत् धावनाङ्कै विजिता आस्ट्रेलिया दलेन भारताय नवत्यूत्तर त्रिशतं धावनाङ्कानां लक्ष्यं संस्थापितम् आसीत्